सप्तशताधिक द्वाषष्टिसहस्राणि अभिनवकोरोना प्रकरणानि अंकितानि

मन की बात अद्य प्रधानमंत्री नरेन्द्र मोदी आकाशवाण्या मन की बातइत्यस्मिन् कार्यक्रमे स्वविचारान् प्रकटितवान् स उक्तवान् यत् अशेषे हि देशे कोविड सूच्यौषधाभियानं स्षठ्रूपेण प्रवर्तते अस्मिन् अभियाने सर्वैः जनैः अवश्यमेव कोविड सूच्यौषधम् स्वीक्रियाताम् तेन प्रोक्तं यत् कोरोना महामारी विरूध्य संघर्षे अस्माभि औषधम् अपि सावधानता अपिअयं मन्त्र अवश्यमेव स्मरितव्य श्रीमता मोदिना प्रोक्तं यत् गतवर्षे प्रथमवारं जना जनता कर्फ्यू इति शब्देन परिचिता जाता तदवसरे जनै अन्शासनस्य यत् अद्वितीयम् उदाहरणं प्रस्त्तं तद् भाविभि वंशजै अवश्यमेव गर्वितभावेन स्वीकरिष्यते सममेव जनै कोरोनाया योद्धन् प्रति यत् समादरं स्थालिकां ताडयित्वा करतलध्वनिभि दीपोज्ज्वलै च प्रदर्शितम् तत् सर्व कोरोना योद्वणां कृते हृदयस्पर्शी अस्ति प्रधानमन्त्री प्रोक्तवान् यत् महामार्या काले कोरोना योद्वार राष्ट्रस्य सर्वेषां नागरिकाणां सुरक्षां सुनिशंचितार्थम अनिशं निसुवार्थ भावेन सेवां कृतवन्त अदय मन की बातइतयस्मिन कार्यक्रमे प्रधानमन्त्रिणा सवतनत्रताया अमृत महोतसवसय उपरि अपि चर्चा कृता स अवादीत् यत् अस्य कार्यक्रमस्य शुभारम्भ महात्मा गान्धिन दाण्डी यात्राया आरम्भदिवसात् विहित

तेन निवेदितं यत् अस्मिन् अवसरे जनैः स्वतन्त्रताया केषांचिदपि सैनिकानां संघर्षस्य वृत्तान्तं कस्यचिद् स्थानस्य इतिहास सांस्कृतिक महत्वं वा प्रकाशे आनीतव्यम् स प्रोक्तवान् यत् अमृत महोत्सवस्य अर्थ अस्ति यत् वयं नवीना संकल्पा क्याम अपि च तान् आप्तुं स्वतंत्रताया सद्रपयोगं पूर्णनिष्ठया भावनया क्याम प्रधानमन्त्री प्रावोचत् यत्सर्वै समाजकल्याणाय राष्ट्रहिताय च अभीक्ष्णम् कार्यम् कर्यात् तेन प्रोक्त यत् इमे संकल्पा नागरिकाणां कर्तव्यानुसारेण अधिकारानुरूपेण च भवितव्या प्रधानमन्त्रिणा प्रोकृतं यत् अस्य मासस्य सदयः जातः महिला दिवसः अपि अतीव महत्त्वप्र्णः आसीत् स प्रोक्तवान् यत् भारतस्य नैका महिला पदकं विजितवत्य स मिताली राज इत्यस्या महिला क्रिकेट कीडिकाया अपि उल्लेख कृतवान् स प्रावोचत् यत् दशकद्वयादपि अधिक समयेभ्यः सा महिला क्रीडिका प्रेरयति ध्यातव्यमस्ति यत् मिताली राज इत्यनया सदय एव दश सहस्रं धावनांका समधिगता प्रधानमन्त्रिणा दिल्लीनगरे अनुवर्तमानायां लक्ष्यवेध विश्व चषक प्रतिस्पर्धायां भारतस्य श्रेष्ठं प्रदर्शनम् अपि प्रशंसितम्

विगतचत्र्विशंतिहोरास् एव देशे एकविंशतिलक्षाधिकेभ्य कोरोणामहामार्या सूच्यौषधि प्रदत्ता एदतन्तराले देशे विगते अहोरात्रे द्वाषष्टिसहस्राधिकानि कोरोणाप्रकरणानि अंकितानि अभिनवकोरोणाप्रकरेणेष् अशीतिप्रतिशतं महाराष्ट्र पंजाब छत्तीसगढ़ कर्नाटक ग्जरात मध्यप्रदेश राज्येभ्यः सन्ति विगतचत्र्विशंतिहोरास् अष्टाविंशंतिसहस्राधिका जना स्वास्थ्यलाभं प्राप्तवन्तः सम्प्रति देशस्य कोरोणास्वस्थतामानं चत्र्णवति दशमलव पंच नव प्रतिशतम् अस्ति

श्रीनगरस्थ नागरविमाननमहानिदेशकेन संतोष ढोके महोदयेन स्वीकृति प्रदानानन्तर सूचित यत् अनेन ग्रीष्मकाले विमानाना उड्डयनसंख्याया पर्याप्तावृद्धि भविष्यति म्यांमा हिंसा म्यांमा देशे निशस्त्रजनान् उपरि सैन्यबलस्य हिंसावसरेशतसंख्यका निशस्त्रजना दिवंगता अमेरिका ब्रिटेन यूरोपीय संघादि द्वादशदेशानां अधिकारिभि घटनामभिलक्ष्य भृंशं निन्दितम् घटनेयं संशस्त्रसेनादिवसस्य समायोजनावसरे प्रवृता आसीत

महिलावर्गेन कजाकिस्तान दलं पराजित्य अपि च प्रुषदलेन स्लोवाकियादलं पराजित्य इदं लब्धम् प्रत्येकमपि दले त्रय त्रय कीडका सन्ति